लोकसभा विपक्षिणां विरोधे सति ऐषमो नागरिकता संशोधन विधेयकं अद्य लोकसभायाम् उपस्थापितम् विधेयकस्य उपस्थापनात् प्राक् सदने मत विभाजनं विहितम् समर्थने त्रि णवति अधिक द्रिशतं तद्रिपरीतं द्वयशीति मतदानानि समागतानि विधेयकेऽस्मिन् विशिष्ट श्रेण्या विदेशिभ्य नागरिकता प्रदानस्य प्रावधानम् उपवर्णितमस्ति विधेयकस्य प्रस्तृतिकाले गृहमन्त्री अमितशाह न्यगादीत् विधेयकमिदं नास्ति अल्पसंख्यक विरूद्धम् नैव खलु एतत् संविधानस्य चतुर्दशाख्यम् अनुच्छेदं अतिक्रामते ध्येयमस्तिं यत् विपक्षिदलै विधेयकमिदं संविधान विरूद्ध प्रतिपादितम् आसीत्

प्रोक्तं च राज्ये तद्दलं विजयते चेत् झारखण्डवासिन कृषका द्वि लक्षात्मकात् ऋणात् म्क्ति प्रदास्यन्ते असौ अद्य हज़ारीबाग जनपदस्थे बडकागांव स्थले नैर्वाचनिकीं जनसभां समुद्रोधयति स्म

बाडा इति विश्व डोपिंग अवरोधि संघटनेनाद्य रूसदेश ओलम्पिक क्रीडा समेत्य सर्वप्रकाराभ्य क्रीडाभ्य निष्कासित